दवानावति दिनेष् एव द्वाविंशति लक्षोत्तर द्वादशकोटि मितादपि अधिकेभ्यो जनेभ्यो सूच्यौषधं प्रदत्तम्

अत्र तेन सबलं प्रतिपादितं यत् महामार्या विरूदधे संघर्षे परीक्षणस्य अभिज्ञानस्य उपचारस्य रीते अनुपालनम् आवश्यकम् स्वसंसदीय क्षेत्रे प्रधानमन्त्रिणा प्रोक्तं यत् संक्रमितानां जनानां सम्पर्के आगतानां जनानां शीघ्रमेव अभिज्ञानं कृत्वा परीक्षण प्रतिवेदनं दीयताम रेमडेसिविर सर्वकारेण प्रतिपादितं यत् आगामिषु पंचदश दिनेषु संक्रमण प्रतिरोधि औषधस्य रेमडेसिविर इत्यस्य उत्पादनं द्विगुणितं करिष्यते

अवधेयास्पदम् अस्ति यत् कोविड संक्रमणे गंभीरतया पीडितानां रोगीणां उपचारे रेमडेसिविर औषधि प्रभावी अस्ति श्रीमता मंडाविया उक्तं यत् सम्प्रति देशे विंशत्यां विनिर्माता संयन्त्रेषु अस्य औषधे उत्पादनं क्रियते एतदतिरिच्य अन्येषु विंशति विनिर्माण स्थलेषु अपि शीघ्रमेव रेमडेसिविर औषधस्य उत्पादनं भविष्यति यै सद्य एव सर्वकारेण अनुमति प्राप्ता अस्ति कोविड अद्यतन गतदिने देशे कोविड संक्रमणस्य सर्वाधिकानि पंच शतोत्तर एकषष्टि सहस्राधिक द्विलक्षमितानि नूतनानि प्रकरणानि पुष्टिंगतानि एषु अशीतिप्रतिशतं संक्रमिता दशराख्यभ्यो एव सन्ति एषु महात्राष्ट्र कर्नाटक छत्तीसगढ़ दिल्ली तमिलनाड़ उत्तरप्रदेश पंजाब्र मध्यप्रदेश गुजराज केरल राज्यानि सन्ति स्वास्थ्य मन्त्रालयेन प्रतिपदितं यत् विगतास्मु चतुर्विंशाति होरासु कोविड रूजय पंचशतोत्तर एकसहस्रजन मृत्युम् उपगत अनेन कोविड संक्रमणेन मृत्युम् उपगतांध संख्यः समेध्य पंचाशदधिक एकशतोत्तर सप्तति सहस्रोत्तर एकलक्ष मित संजाम अस्ति स्वास्थ्य मन्त्रालयेन संसूचितं यत् साम्प्रतं अष्टादलक्षादपि अधिका जना संक्रमिता सन्ति ये चिकित्सालयेषु स्वगृहेषु वा उपचाराधीना सन्ति देशे कोरोना संक्रमणाप् स्वस्थीभू ानां जनानां प्रपिश ा अपि अपचीय षडशी दशमलव षड् द्वे मि ा अस्ति

साम्प्रां यावप् देशे अष्टाविंशपि लक्षाधिक एककोटि जना कोविड संक्रमणाप मुक्रा अभवन् अखिले हि देशे साम्प्रतं यावत् पंचषष्टि लक्षाधिक द्वाषष्टि कोटि मितादपि कोरोना परीक्षणानि संजातानि भारतीय आयुर्विज्ञान अनुसन्धान परिषदा आईसीएमआर इत्यमुना प्रतिपादितं यत् गतदिने षष्टि सहस्राधिक पंचदश लक्षादपि अधिकानि परीक्षणानि कृतानि परिषदा संसूचितं यत् इदानीं देशे कोरोना प्रतिदर्श परीक्षणस्य त्रिषष्टि अधिक चतुश्शतोत्तर द्विसहस्र प्रयोगशालाः वर्तन्ते एषु त्रयश्तिंशत् अधिक द्विशतोत्तर एकसहस्राधिक शासकीय प्रयोगशाला अपि च त्रिंशदाधिक द्विशतोत्तर एकसहस्राधिक शासकीयत्तर प्रयोगशाला सन्ति संस्कृतवार्ताया संस्करणमिदं इदानी आकाशवाणीतः प्रसार्यते

रेलवे परिवहन रेलविभागेन द्रवित चिकित्सकीय प्राणावायो भारतीय धारक ट्कयानानां रेलयानमाध्यमेन गमनागमनस्य सौविध्यस्य अनुमति नैतिकरूपेण प्रदत्ता अयं निर्णय महाराष्ट्र राज्यस्य राज्ये द्रवित चिकित्सकीय प्राणवायोः आपूर्तये कृतनिवेदनान्तरं गृहीत रेल विभागेन प्रतिपादितं यत् अनेने पदक्रमेण प्राणावायो आपूर्त्यां समयस्य मूल्यस्य च रक्षणं भविष्यति सममेव कोविड संक्रमणे वृद्धि निध्याय आवश्यक चिकित्सकीय सौविध्यानाम् आपूर्तये अयं पदन्यासो महत्वपूर्ण सिद्धं भविष्यति

अस्मिन् पत्र तव्व उल्लिखितं यत् सर्वकारण सूच्यौषधिकरण विशष्ठरूपत्रा ध्यानं प्रदानस्य आवश्यकता अस्ति डॉ सिंहप्ठ लिखितं यत् सूच्यौषधप्त लाभान्वितानां जनानां संख्याया अप्रक्राया अखिल जनसंख्याया कियत्प्रतिशतं जना सूच्यौषधि कृता एतद् अधिकं महत्वपूर्णम् अस्ति श्रीमता सिंहप्त लिखितं यत् अस्मिन् समयासर्वकारण स्वास्थ्य सव्रायां सक्रिय रूपण अनुक्रियाशीलेन च कार्यं कुर्यात् सममेव सूच्यौषध उत्पादनकतृभ्य धनावण्टनस्य आवश्यकता अस्ति अनेन सूच्यौषधस्य उत्पादन क्षमतायां वृद्धि भविष्यति कर्नाटक जल जीवन कर्नाटक प्रशासेन प्रतिपादितं यत् अग्रिम वर्षस्य मार्च मासपर्यन्तं पंचविंशति लक्ष जनेभ्यो नलिका द्वारा जलप्राप्ते सौविध्यं भविष्पति अवधेयास्पदम् अस्ति यत् जल जीवन आभीयानं केन्द्रीय सर्वकारस्य एकं महत्वपूर्णम् अभियानम् अस्ति यस्य उद्देश प्रत्येकनागरिकं नलिका द्वारा पेयजलस्य प्रापणम् अस्ति जलशक्ति मन्त्रालयेन प्रतिपादितं यत् कर्नाटक राज्ये साम्प्रतं यावत् त्रयोविंशति पंचायत षड् सप्तत्युत्तर षड्शतं ग्रामा हर घर जल इतिरूपेण उद्घोषिता सन्ति दिल्ली दिल्ल्या मुख्यमन्त्री अरविन्द केजरीवाल इत्यमुना प्रतिपादितं यत् गतदिने राजधान्यां पंचशतोत्तर पंचविंशति सहस्राधिका जना कोरोना विषाणो संक्रमिता जाता इदानीं संक्रमणस्य मिति विवर्ध्य त्रिंशत् प्रतिशतं संजाता आभासीय संवाददाता सम्मेलने मुख्यमन्त्रिणा प्रतिपादितं यत् इदानीम् अपि दिल्ल्यां दशसहस्र शय्या उपलब्धा एषु केन्द्रीय सर्वकारस्य अपि चिकित्सालया सन्ति एषु अष्टशतोत्तर एकसहस्र शय्या कोविड संक्रमितानां कृते आरक्षिता सन्ति तेन निवेदितं यत् केन्द्रीय सर्वकारै सप्तसहस्र शय्या कोविड संक्रमणात् गंभीररूपेण पीडितानां कृते आरक्षितं कुर्यात् मुख्यमन्त्रिणा प्रतिपादितं यत् चिकित्सालयेषु शतादपि न्यूनानि आईसीयू शय्या रिक्ता सन्ति सममेव स्थितौ प्रतिक्षणं विकृति एव जायते सुच्यौषधम् सूच्यौषधिकरणे भारतेन एकं नूतनं कीर्तिमजं स्थापितम् द्वामाबति दिनेषु एव द्वाविंशति लक्षोत्तर द्वाद्वशकोटि मिताद्वपि अधिकेभ्यो जनेभ्यो सूच्यौषधं प्रदत्तम् स्वास्थ्य मन्त्रालयेन प्रतिपदितं यत् गतदिने चतुरशीति सहस्राधिक षड्विंशति लक्षजनेभ्यो सूच्यौषधं प्रदत्तम् आसीत् राहुल गांधी कांग्रेस दलीय नेत्रा राहुल गांधी इत्यमुना देशे कोविड महामार्या संक्रमणे वृद्धि निध्याय स्व सर्वा भावि जनसभा स्थगिता